देशे अद्यावधौ त्रयोविंशत्यधिक त्रयोदश कोटि जनै कोरोना प्रतिरोधि सूच्यौषधम् सम्प्राप्तम्

अष्टसप्तत्यधिकैक लक्षजना स्वस्थीभूता पश्चिमबंगाले विधानसभा निर्वाचनस्य षष्ठतम चरणस्य मतदानं सम्प्रति प्रचलति अदय प्रधानमन्त्री नरेन्द्रमोदी जलवायो विषयम् अभिलक्ष्य नेतृणां सम्मेलने प्रतिभागितां करिष्यति आई पी एल इत्यस्मिन् क्रिकेट प्रतिस्पर्धायां अदय रॉयल चैलेंजर्स बेंगलुरू इत्यस्य प्रतिस्पर्धा राजस्थान रॉयल्य इत्यनेन साकं भविष्यति कोविड सन्देश प्रिया श्रोतार कोविड ऊनविंशतिइत्यस्या संक्रमणे वृद्धि प्नर्जायते एतदर्थ निवेद्यते यत् असावधानतां मा व्यवहरन्त्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 भवन्त भवत्यश्च सुरक्षाया उपायव्रयस्य संकल्पं स्वीकृत्य सुरक्षिता भवन्तु म्खनासिकावरकं सन्धारयन्त् दैहिकदौर्य परिपालयन्त्र पाणिपादं च यथासमयं प्रक्षालयन्तु औषधं अपि समवधानता अपि

देशे कोविड नवदश संक्रमणम् रोदध् सर्वकारस्य प्रयासेष् सम्प्रति भारतीय वाय् सैन्य बलम् अपि सम्मिलितम् अस्ति बलमिदं आवश्यकानां सूच्योषधानां उपकरणानां प्राण वायोश्चकृते कार्य करिष्यति तट्रैव रक्षामन्त्रिणा राजनाथसिंहेन गतवासरे दृश्य श्रव्य माध्यमेन एकंउपवेशनं कृतं यत्र सैन्यबलानां वरिष्ठा अधिकारिण सम्मिलिता आसन् तेन रक्षा प्रतिष्ठानानि देशे कोविड महामारीम् अपाकर्त्म् आश्वासनमपि प्रदत्तम कोविड सच्यौषधम समग्र देशे कोविड सूच्यौषधकरण अभियानं सम्यक् रूपेण प्रचलति

तंत्रैव देशे अद्यावधौ प्रायश चत्र्दश कोटि जना अनेन सूच्यौषधेन लाभान्विता जाता

स्वास्थ्य मन्त्रालयेन प्रतिपादितं यत् विगते अहोरात्रे चत्र्दशसहस्राधिक त्रिलक्ष जना संक्रमिता जाता तत्रैव एकनवत्यधिक द्वाविंशतिलक्ष रोगिण उपचाराधीना वर्तन्ते

सहैव कोरोना महामार्याः स्वस्थतामितिः साम्प्रतं चत्रशीतिदशमलव चत्वारि पञ्चमिता एव अंकिता अवधेयास्पदं वर्तते यत् विगतासू चतूर्विशतिहोरासू अष्टसप्तत्यधिकैकलक्षजना स्वस्थीभूय गृहं प्रत्यागता

योग्यजना कोविन पोर्टल कोविन डॉट जी ओ वी डॉट इन इत्यस्मिन्पत्रजीकरणं कर्त् शक्न्वन्ति केन्द्रीय स्वास्थ्य मन्त्री डॉक्टर हर्षवर्धन अकथयत् यत् सर्वे जना पञ्जीकरणाय तत्परा भवेय् यतो हि अग्रिममासस्य प्रथम दिनांकात् आरभ्य सुच्योषधदान प्रक्रिया भविष्यति पश्चिमबंगाल मतदान पश्चिम बंगाले विधानसभा निर्वाचनस्य षष्ठतम चक्रस्य मतदानं अध्ना प्रचलति मतदानं प्रातकाले सप्तवादनत सायं सार्ध षड़वादन पर्यन्तं प्रचलिष्यति आयोगेनमतदानस्य अस्मिन् चरणे स्रक्षाया प्रबन्धनम् उचितं कृतम् आयोगेन प्रतिपादितम् यत् निर्वाचन प्रक्रियाया वातावरण स्वतन्त्रं निष्पक्षं शान्तिपूर्वकं च भवेत्

अवधेयास्पदम् अस्ति यत् अमेरिकायाः राष्ट्रपतिना जो बायडेन इत्यम्ना सम्मेलने प्रतिभागार्थं प्रधानमन्त्रीं निमन्त्रितः आसीत् इदं सम्मेलनं जलवायोः विषयोपरि केन्द्रितानां सम्मेलनानां शंखलायाः भागः अस्ति भारत बायोटेक भारत बायोटेक भारतीय आयुर्विज्ञान अनुसंधान परिषदः स्वदेशी कोरोना विषाणु प्रतिरोधि सृच्यौषधस्य कोवैक्सीन इत्यस्य प्रारम्भिक परिणामाः उदघोषिताः अस्य सृच्यौषधस्य नैदानिक क्षमता अष्ट सप्तति प्रतिशन्मिता अस्ति भारतबायोटेक इत्यनया संस्थया संसुचितं यत् इदं सूच्यौषधं कोविड संक्रमणेन गभीररूपेण पीडितानाम् उपचारे विशेषरूपेण प्रभावी अस्ति मन की बात प्रधानमंत्री नरेन्द्र मोदी आकाशवाण्या मन की बात इत्यस्मिन् कार्यक्रमे स्वविचारान् प्रकटितवान् स उक्तवान् यत् अशेषे हि देशे कोविड सूच्यौषधाभियानं सृष्ठुरूपेण प्रवर्तते अस्मिन् अभियाने सर्वै जनै अवश्यमेव कोविड सुच्यौषधम् स्वीक्रियाताम् तेन प्रोक्तं यत् कोरोना महामारी विरूध्य संघर्षे अस्माभि औषधम् अपि सावधानता अपि अयं मन्त्र अवश्यमेव स्मरितव्य श्रीमता मोदिना प्रोक्तं यत् गतवर्षे प्रथमवारं जना जनता कर्फ्यू इति शब्देन परिचिता जाता तदवसरे जनै अन्शासनस्य यत् अदवितीयम् उदाहरणं प्रस्तृतं तद भाविभि वंशजै अवश्यमेव गर्वितभावेन स्वीकरिष्यते सममेव जनै कोरोनाया योदधन् प्रति यत् समादरं स्थालिकां ताडयित्वा करतलध्वनिभि दीपोज्ज्वलै च प्रदर्शितम् तत् सर्व कोरोना योद्धृणां कृते हृदयस्पर्शी अस्ति प्रधानमन्त्री प्रोक्तवान् यत् महामार्या काले कोरोना योदधार राष्ट्रस्य सर्वेषां नागरिकाणां स्रक्षां स्निश्चितार्थम् अनिशं निस्वार्थ भावेन सेवां कृतवन्त

यतो हि तत्रापि कोरोना महामार्या द्ष्प्रभावं परिलक्षति

इयं क्रिकेट प्रतिस्पर्धा मुम्बई महानगरस्य वानखेड़े क्रिकेट कीडांगणे सायं सार्ध सप्तवादने भविष्यति